भारत वेस्ट इण्डीजयोः मध्ये प्रवर्तमानायाः विंशति प्रतिविंशति क्षेपचक्रीय क्रिकेट श़ङ्खलायाः प्रथमा स्पर्धा गतरात्रौ भारतेन विजिता

अष्टादशस् विधानसभा क्षेत्रेष् प्रातः सप्त वादनतः साय त्रिबादन यावत् मतदान भविष्यति

गतदिने नवदिल्ल्यां प्रशासनेतर वार्ताभिकरणानां सम्मेलने श्रीमोदिनोक्तं यत् बैंकक्षेत्रं सम्प्रति संकटात् समुदधृतम् परं केनापि समुचिताय व्यापार सम्बद्ध निर्णयाय प्रश्नाः नैव पृच्छयन्ते सममेव प्रधानमन्त्री श्रीमोदी त्रिशद्त्रैक शत कोटि जनाना भावि जीवनाय प्रौद्योगिक्याः समूचितक्रियान्वयन समर्थितवान् तेन नागरिकाणा कल्याणाय जीवन स्गमतायै सम्चित प्रशासनाय च राष्ट्रिय जनतांत्रिक संयुति प्रशासनस्य निर्णयाः सविस्तरं समुल्लिखिताः रक्षामंत्रालयः रक्षामन्त्रालयेन स्वच्छता पक्षस्य अन्तर्गतम् अद्य देशे चतुश्शताधिकेष् स्थानेष् भ्रमणेन सह प्लास्टिक स्यूतानां संचयक्रार्यक्रमः समायोज्यते अस्योद्देश्यं समाजे स्वच्छतायै जनजागरणं विद्यते रक्षामन्त्री राजनाथसिंहः अद्य नवदिल्ल्यां सैन्यशिविरःक्षेत्रे हरित ध्वज प्रदर्शनेन सह अस्योद्घाटनं विधास्यति आरक्षिस्थात्रम् अण्डमान निकोबार द्वीप समूहस्य अबेरदीन आरक्षि स्थात्रेण देशस्य आरक्षिस्थात्रेष् प्रथमं स्थानम् अवाप्तम् सम्पत्ति सम्बद्धापराधानां निराकरणाय महिलाः निर्बल वर्गाध विरुध्य अपराधानां नियन्त्रणाय च अनेन स्थात्रेण स्वीय उत्कृष्ट प्रदर्शनाय शीर्षस्थानम् अधिगतम्